श्रीमोदी निगदति यद भाररत फ्रांस देशौ आतंकवाद प्रतिकर्तु सुरक्षार्थं च सहयोगं विधास्यतः श्रीमोदी ऑर्डर ऑफ जायेद इति संयक्तारबदेशस्य सर्वोच्च नागरिक सम्मान प्राप्तयर्थम् अद्य संयृतारबदेशस्य यात्रां विधास्यति

प्रधानमंत्री फ्रांसम् फ्रांस राष्ट्रपतिना इमैनुअल मैक्रोनेन प्रोक्तं यत् कश्मीर समस्यायाः समाधानं भारत पाकिस्तान देशाभ्यां द्विपाक्षिकरीत्या भवेत् क्षेत्रेऽस्मिन् केनाऽपि तृतीयपक्षेण हस्तक्षेपः नैव कर्त्तव्यः चेट्य डी चैन्टील्ली स्थले प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पारस्परिक सम्भाषणस्य अनन्तरं फ्रांस राष्ट्रपतिना एतत् निगदितम् प्रधानमन्त्री श्री नरेन्द्रमोदी फ्रांस राष्ट्रपतिना इनैनुअल मैक्रोनेन सह विविध विषयेष् सम्भाषणं क्रतवान् नेतृदय मध्ये द्विपाक्षिकान् पारस्परिकहितविषयान् सामरिक सहभागित्व संवर्धन चालक्ष्य परिचर्चा सव्जाता

यात्रायाः प्रस्थानात् पूर्व प्रधानमंत्रिणा प्रोक्तं यत् तस्य फ्रांस यात्रेयं द्वयोः देशयोः सुदृढं रणनीतिक सहभागित्वं प्रकटयति फ्रांसयात्रायाः अनन्तरं श्रीमोदी अद्य संयुक्तारबामीरातं प्राप्स्यति यत्र तद्देशीयः सर्वोच्च सम्मानः ऑडर ऑफ जायेदः तस्मै समपंथिष्यते तदनन्तरं श्रीमोदी बहरीनस्य यात्रां विधास्यति असौ तत्रत्येन शासकेन शेख इमाद बिन ईसा अल खलीफा इत्यनेन सह सम्भाषणं विधास्यति सीबीआई चिदम्बरम् दिल्ली स्थितेन एकेन न्यायालयेन गतदिन आईएनएक्स सञ्चारमाध्यम भ्रष्टाचार प्रकरणे प्राक्तन वित्तमन्त्रिणे चत्र्दिवसीय केन्द्रीयान्वीक्षणामिकरणीय निगडनाय आदेशः प्रदत्तः न्यायमूर्तिना अजय कुमार कुहरेण प्रोक्त यत् तथ्यान्वीक्षणानन्तरं चिदम्बरस्य अस्यमासस्य षड्विंशदिवसपर्यन्तं न्यायायिक निगडनं न्यायोचितम् ई डी राजठाकरे महाराष्ट्रनवनिर्माणसेनादलस्य अध्यक्षः राजठाकरे गतदिने धनशोधन प्रकरणे प्रवर्तननिदेशालयेन परिपृष्टः परिपुच्छानन्तरं गमनाय तस्मै अनुमतिः प्रदत्ता चन्द्रयानम् भारतस्य चन्द्रयान द्वितीय इत्येन गतदिने चन्द्रमसः तलात् पृथ्वीं प्रति एकं चित्रं प्रेषितम् चन्द्रमसः कक्षायां सम्प्राप्तेः अनन्तरं चित्रमिदं प्रेषितम्

महात्मागान्धिनः साधैंक शततमी जयन्त्यवसरे ऑक्सफोर्ड यूनिवर्सिटी प्रेस इत्यस्य सहयोगेन भारतीय राष्ट्रिय लेखागारेण अस्य पुस्तकस्य प्रकाशनं जातम् अवसरेऽस्मिन् सम्भाषमानेन श्रीपटेलेन प्रोक्तम् अनेन अनुवादेन महात्मगान्धिनः जीवन परिचयः अखिल विश्वाय प्राप्स्यते बैडमिण्टन गतदिने स्विटजरलैण्डदेशे समायोजितायाः वी डब्ल्यू एफ विश्वनायक स्पर्धायाः प्रागुपान्त्यचक्रीय बैडमिण्टन स्पर्धाया पीवी सिन्धुना अमेरिकादेशस्य वीवेन झांग पराजिता